महाराष्ट्र प्रशासनम् महाराष्ट्रे प्रशासन विरचन प्रक्रिया तीव्रीभूतास्ति प्रशासन विरचने सम्प्रति केवलं दिनद्रयमेव अवशिष्टम्

गृहमन्त्री अमितशाह कार्यक्रमस्य आध्यक्ष्यं सम्भालयिष्यति

स्पर्धेयम अद्य सायं एण्टीगुआयां सप्तवादने समारप्स्यते